साम्प्रतं यावत् सप्तनवति दशमलव त्रि त्रि प्रतिशत जना स्वस्थीभूता च

अपि चभारतस्य सूचना प्रोद्योगिकी क्षेत्रकै स्वविविधयोजनाभि नैकानि कार्याणि विहितानि यै भारतम् आत्मनिर्भररूपेण व्यवहरति विविध देशेभ्यो च स्वदेशीय कोविड स्च्यौषधम् वितरति स प्रावोचत् यत् भविष्यनेत्रूपेण विकासाय बाधा न भवितव्या अत वि प्रशासनेन प्रौद्योगिकी सम्बन्धी विविध अनावश्यक नियमानां निराकरणाय प्रयासं क्रियतेराष्ट्रीय आंकिकी संचार नीतिअस्यां दिशि महत्वपूर्णो प्रक्रमो विद्यते अस्या ि परिणामो वर्तते यत् बहव भारतीय जना धनस्य आदान प्रदानाय बहुश आन्तर्जालीय माध्यमस्य प्रयोगं कुर्वन्ति स आवादीत् यत् सद्य प्रख्यापिता भू स्थैतिकी सम्बद्ध दिन्निर्देशा मानचित्रणे भूस्थैतिकी अभिलेखानां संग्रहणस्य दिशि नवाचारकर्तभ्यो महत्वाधायी आस्ति

संक्षिप्तोद्वोधने संचार मन्त्रिणा रविशंकर प्रसादेन निगदितं यत् अस्मैक्षेत्राय पंचनवत्युत्तरैकशताधिक द्वादशसहस्र कोटिरूप्यकाणा राशि निस्सारिता स अग्रे उक्तवान् यत् अनेन चत्वारिंशत् सहस्राणि प्राय प्रत्यक्षाप्रत्यक्ष वृत्तय सृजिता भविष्यन्ति

संघीयमन्त्रिमण्डलद्वारा अनुशंसित प्रकरणेषु तृतीय मॉरिसस देशेन सह अर्थतंत्रीय सहयोगात्मक आसीत यस्मिन् विषये ब्र्वन् सूचनाप्रसारणमन्त्रिणा प्रकाश जावडेकरेण निगदितं यत् अनेन अनयोदेशयो मध्ये व्यापार सम्बन्ध सुदृढ भविष्यति

जल जीवन मिशन राष्ट्रे जल जीवनाभियान अन्तर्गते त्रिपंचाशत् लक्षाधिक त्रिकोटि ग्रामीणा नलिकाद्वारा जलप्राप्ते सौविध्यं लभन्ते सम्प्रति

यस्य उद्देश्यं सर्वेभ्यो ग्राम वास्त्वयेभ्यो नलिकाद्वारा जल प्रापणस्य सौविध्यं प्रदानमस्ति जल शक्ति मन्त्रालयानुसारि सार्धैकवर्षपूर्वं ग्रामीण जनानां संख्याया केवलम् अष्टादश दशमलव नव परिमिता जना वे नलिकाद्वारा जलं प्राप्तन्वन्ति स्म ये सम्प्रति विवर्ध्य पंचत्रिंशत् प्रतिशतमिता जाता हर्षास्पदमस्ति यत् तेलंगाना अनन्तरं सम्प्रति गोवा अपि ईद्रशं राज्यं वर्तते यत् शतप्रतिशतजनेभ्यो नलिकाद्वारा जलप्राप्ति सु्निश्चिता अभवत् कोविड अशेष देशे कोविड सूच्यौषधाभियानं सजवं प्रवर्तते साम्प्रतं यावत् सप्तनवति दशमलव त्रि त्रि प्रतिशत जना स्वस्थीभूता च

अनेन सह आहत्य स्वस्थीभूतानां जनानां संख्या अष्ट पंचाशत् अधिक अष्टशतोत्तर चतुश्चत्वार्रिशत् सहम्राधिक किकोटि जना स्वस्थीभूता सन्ति

ते तत्र विविध पर्यटन सम्बद्धेष् स्थलेष् परिभ्रमन्त काश्मीरत श्व जम्मुम् समागमिष्यन्ति अद्य तै तत्र मागम क्षेत्रे सद्यनिर्वाचितै जनपद प्रतिनिधिभि सह मेलनं कृतम्

वित्तमन्त्रालयेन प्रोक्तं यत् गुजरात उत्तरप्रदेश उत्तराखण्ड राज्यैरपि नीतिरेषा समारब्धा

मन्त्रालयेनोक्तं यत् इत पूर्वम् वि आन्ध्रप्रदेश असम हरियाणा हिमाचलप्रदेश कर्नाटक केरल मध्यप्रदेश ओडिशा पंजाब राजस्थान तमिलनाडु तेलंगाना च प्रदेशा नीतिरेषा समारब्धवन्त

अमित शाह संघीय गृहमन्त्री भाजपा नेता अमित शाह त्रिदिवसीय यात्रायै अद्य कोलकातां प्रति प्रस्थानं करिष्यति तत्र श्व प्रात कोलकातायां भारत सेवाश्रम संघं प्रति तदनन्तरं गंगासागरस्थ कपिलमुने आश्रमं प्रति च गमिष्यति त्रेदतिरिच्य स चौबीस परगना जनपदस्य काकद्वीप क्षेत्रे भाजपा दलस्य अन्तिमां नैर्वाचनिकीं यात्रां च उद्घाटयिष्यति

भारतदलस्य च पुरोधा आसीत् विदेश मंत्रालयस्य संयुक्त सचिव प्रकाश गुप्तावर्य सहैव मोस्कोस्थ भारतीय उच्चायुक्तश्च सहभागी अभवत् तत्र संयुक्तराष्ट्र सुरक्षा परिषद् संबद्धा विषया चर्चिता उभावपि पक्षौ सहमतौ पारस्परिक सहयोगाय क्रीभूय कार्य निष्पादनाय च